छठ ीी आस्थायाः महापर्व अद्य देशस्य विभिन्नेष् भागेष् सश्रद्ध सोत्साहं च आमान्यते गतरात्री ओडिशा राज्ये भुवनेश्वरे टोकियो ओलिम्पिक्स् अहर्तायाः प्रथमे चरणे पुरुष हॉकी स्पर्धायां भारतेन रूसदलं चत्वारि द्वे क्वि गोलकान्तरालेन पराजितम् प्रधानमन्त्रीथाइलैण्डम् प्रधानमन्त्री नरेन्द्र मोदी थाईलैण्डस्य त्रि दिवस व्यापिन्यै यात्रायै अद्य प्रातः बैंकॉकं प्रति प्रतिष्ठते यात्रावधौ प्रधानमन्त्री षोडशे आसियान भारत शिखरोपवेशने चतूर्दशे पूर्वेशिया शिखरोपवशने तृतीये क्षेत्रीय समग्रार्थिक सहभागिता सम्मेलने तत्सम्बद्ध कार्यक्रमेष् च सहभागित्वमावक्ष्यति पूर्वीयदेश सचिवा विजय सिंह ठाक्रः वार्ताहरान् व्यज्ञापयत् यत् थाईलैण्ड प्रधानमन्त्रिणः प्रय्त चान् ओ चा वर्यस्य आमन्त्रणम अड़गीकत्य श्री मोदी बैंकॉक प्रयाति सर्वप्रथम बैंकॉकस्थे राष्ट्रियाभ्यन्तरीण क्रीडाङ्गणे प्रधानमन्त्री श्री मोदी अद्य भारतीय समुदायं संबोधयिष्यति अत्रावसरे असौ गुरु नानक देवस्य सार्ध पञ्चशततर्मी जयन्तीम् उपलक्ष्य तिरुक्क्रलेति तमिल साहित्यस्य थाई भाषान्वाद विषयं च अभिलक्ष्य स्मारक नाणके लोकाय अर्पयिष्यति गडकरीवाहनाधिनियम केन्द्रीय परिवहन मन्त्री नितिन गडकरी न्यगादीत् यत् एकोनविंशत्यधिक द्विसहस्रतम वर्षीयो वाहन संशोधनाधिनियमः धनसंचयार्थं न अपित् जन जीवन रक्षार्थम् अभ्यूपगतः मुम्बय्याम् एकस्मिन् समारोहे अभिभाषमाणः श्री गडकरी अवादीत् यत् मार्गीय दर्घटनास् प्रतिवर्ष प्रायः सार्ढैक लक्ष मिताः जनाः मृत्युम्पगच्छन्ति नैके चान्ये आहताः भूत्वा विकलाङ्गत्वञ्च गच्छन्ति छठ पर्व छठ ी आस्थायाः महापर्व अद्य देशस्य विभिन्नेष् भागेष् सश्रद्ध सोत्साहं च आमान्यते श्रद्धालवः अद्य अस्त गच्छते दिनकराय अर्घ्याञ्जलीन् प्रदास्यन्ति चतुर्दिवसात्मकस्य अस्य पर्वणः चतुर्थे अन्तिमे च दिवसे श्वः श्रद्धालुभिः उदीयमानो दिवाकरः सम्पूजयिष्यते

वित्तमन्त्रिणा निर्मला सीतारमणेन अमेरिकीय वित्तमन्त्रिणा स्टीवन टी मन्चीनेन संयुक्तरूपेण अस्योपवेशनस्य आध्यक्ष्य विहितम् वार्ताहैरः सह सम्भाषमाणया श्रीमत्या सीतारमणवर्यया प्रोक्त यद उपवेशनेऽस्मिन् पारस्परिक सहयोग संवर्धनार्थम् उभाभ्यां पक्षाभ्यां सविस्तरं परिचर्चितम्

शस्यावशेषाणा प्रज्वालनम् अवरोद्धम् अथ च अस्य द्ष्प्रभावविषये जागरूकता प्रसारणार्थ कार्यक्रमं प्रवर्तितुं कृषिविभागो विनिर्दिष्टः

भारतीय दलनायकः कैप्टन मनप्रीत सिंहः स्पर्धापुरो घोषितः